राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च श्रद्धांजलीः समर्पितवन्तः

न्यायालयेन सर्वकारस्य कृषकसंघटनानां च मध्ये वार्तालापाय एकस्याः विशेषज्ञसमितेः घटनम् अपि कृतम् अस्ति मुख्यन्यायधीशेन एसए बोबडेमहोदयस्य आध्यक्षय्तेन पीठेन प्रोक्तं यत् ये केऽपि अस्य गतिरोधस्य द्रीकरणाय इच्छ्काः ते अवश्यं समितेः समक्षं समुपस्थिताः भविष्यन्ति मुख्यन्यायधीशेन सममेवापि इदं प्रोक्तं यत् समितेः कार्यं आदेशदण्डयोः विधानं न भविष्यति अपित् समितिः स्वीयं मूल्यांकनं न्यायालयसमक्षं प्रस्तौष्यति

श्रीमोदिना द्रश्यश्रव्यसंवाद तन्त्र द्वारा प्रातः दशवादने सत्रमिदं सम्बोधितम् अस्मिन्नवसरे श्रीमोदी न्यगादीत् यत् नवीन राष्ट्रिय शिक्षानीतेः मुख्यमुद्देश्यं उत्तमव्यक्तिनिर्माणद्वारा राष्ट्रनिर्माणम् इति वर्तते तेनोक्तं यत् नवीन नीतौ य्वभ्यः तेषां विचारविकासाय प्राथम्येन अवसरः प्रदत्तः अस्ति श्रीमोदिनोक्तं यत् सममेव सर्वकारः एतादूशवातावरणनिर्माणाय प्रयत्नरतः अस्ति यद्वारा युवभ्यः श्रेष्ठा अवसराः प्राप्ताः भवेयुः स्वामि विवेकानन्दं स्मरता श्रीमोदी अवोचत् यत् स्वामीजी सदैव यूनां शारीरिक मानसिकविकासस्य च उपरि बलं प्रादात् प्रधानमन्त्रिणा इदमपि उक्तं यत् स्वामिविवेकानन्दः यान् अध्यात्म राष्ट्रवाद राष्ट्रनिर्माण मानवता सेवादीनां विचारान् व्यक्तीकृतवान् ते च विचाराः अद्यापि अस्माकं जनानां मनस्स विद्यामानाः सन्ति

अवसरेऽस्मिन् राष्ट्रपतिना समुदीरितं यत् स्वामी विवेकानन्दः मानवतायाः कृते अपि च युवजनेभ्यः प्रेरणास्रोतः आसीत् अनेनैव राष्ट्रस्य आध्यात्मिक न्यासस्य प्रसारः विश्वे आध्यात्मिकी भावना च जागरिता

अथ उपराष्ट्रपतिना एम वैंकैया नायड्नापि स्वामिनः जयन्त्यावसरे प्रोक्तं यत् असौ असाधारणप्रतिभासम्पन्नः अन्द्र्तवक्ता अपि च सत्यनिष्ठः राष्ट्रवादी आसीत् अवधेयास्पदं वर्तते यत् अस्यैव जन्मजयन्तिदिनं आभारते राष्ट्रिय य्व दिवसः नाम्ना आचर्यते अत एव उपराष्ट्रपतिना य्वभ्यः समाकारितं यत् युवानः प्रेरणापथरूपेण अस्यजीवनं दृष्टवा नवभारतस्य निर्माणे अपि च निर्धनता निरक्षरता भ्रष्टाचार भेदभावरहितस्य भारतस्य निर्माणे संग्लग्नाः भवेय्ः अत्रैव प्रधानमन्त्रिणापि उक्तं यत् स्वामिविवेकानन्दः स्वविचारैः कार्यैः च भारतीयसंस्कृतेः चेतनायाः मूर्तिमान् रूपत्वेन आसीत् कोविड् सूच्यौषधम् कोरोना महामार्याः सूच्यौषधं सार्धद्विलक्षमितात् अधिकसंख्यायाम् अद्य ग्जरातस्य अहमदाबाद वायुस्थानकं प्रापितम् राज्य उपमुख्यमन्त्री नितिनपटेलः उच्च अधिकारिभिः सार्धं प्रथमं सूच्यौषधपुर्ट गृहतीवान् वार्ताहरान् सम्बोधयता नितिनपटेलेन प्रोक्तं यत् राज्ये सूच्यौषधीकरणं अस्य मासस्य षोडशदिनांकतः भविष्यति सममेव अनयारीत्या भारतस्य अन्येभ्यः महानगरेभ्यः नगरेभ्यः च सूच्यौषधप्रापणस्य कार्यं तीव्रगत्या प्रारब्धमस्ति अवधेयास्पदं वर्तते यत् निखिलेपि देशे प्रथमचरणे सूच्यौषधिकरणम् षोडशतमात् दिनांकात् प्रारप्स्यते

कोविड अपड्ट देशे कोविड ऊनविंशतेः स्वस्थतामितिः संवर्ध्य षण्णवति दशमलव चतुः नवप्रतिशतमिता संजाता विगतचतुर्विंशति होरासु अष्टादशसहस्रतोऽपि अधिकाः जनाः स्वस्थीभूय गृहं प्रत्यागताः स्वास्थमन्त्रालयानुसारि यत् निखिलेऽपि विश्वे भारतस्य स्वस्थतामानं सर्वतोऽधिकं वर्तते सम्प्रति देशे महामारीतः संक्रमितानां संख्या षोडशसहस्राधिक द्विलक्षमिता अस्ति संवृता विगते अहोरात्रे चतुरशीति उत्तर पञ्चशतोत्तर द्वादशसहस्रं जनाः रोगेनानेन ग्रस्ताः अभवन् तत्रैव सप्तषषष्टि उत्तर एकशतं जना महामारीतः कालकवलिताः सञ्जाताः

दृश्य श्रव्य संवाद तन्त्र द्वारा समायोजितेऽस्मिन् अस्मिन् सम्मेलने उभौ सुरक्षासहयोगस्य उपरि सन्तोष ज्ञापितवन्तौ उभौ दिसम्बर मासे जाते भारतीय प्रधानमन्त्रिणः वियतनाम प्रधानमन्त्रिणः च मध्ये संवादे निर्धारितान् बिन्दन् अपि क्रियान्वयनाय चर्चितवन्तौ

इमानि राज्यानि केरल राजस्थान हिमाचल हरियाणा उत्तर प्रदेशादीनि वर्तन्ते नवदिल्यां पश्पालन दग्धोत्पादनमन्त्रिणा वार्ताहराः संसूचिताः यत् राज्येभ्यः अस्य रोगस्य निराकरणाय वारत्रयं सूचना प्रदत्ता आसीत् परन्तु राज्यैः अस्योपशमनाय सक्रिय उचितोपक्रमाः नोत्थापिताः